उज़्बेकिस्तान भारत प्रधानमंत्री श्री नरेन्द्रमोदी उज़्बेकिस्तानदेशस्य राष्ट्राध्यक्षेण शौकत मिर्जियोयेव वर्येण सह प्रथमे उच्चस्तरीय भासी उपवेशने कोरोणामहामारी सन्दर्भे उभयोः देशयोः द्विपक्षीय पारस्परिक पक्षाणां वर्धने बलं दतवान्

अत्रावसरे असौ न्यगादीत् यत् उभौ देशौ अफगानिस्तान देशेऽपि शान्तिप्रक्रियायः समर्थकौ स्तः भारती महोत्सव अदय श्री नरेन्द्रमोदीः तमिलभाषायाः जनकविः श्री सुब्रह्मण्यम् भारतीपादानां सम्माने समायोजितम् प्रथमं अन्ताराष्ट्रियभारतीमहोत्सवं संबोधितवान् श्रीमोदीः उक्तवान् यत् श्रीभारतीः एकांगी प्रतिभापूरितः कविरेव नासीत् अपित् सः कविः लेखकः सम्पादकः पत्रकारः सामाजिक परिवर्तनकारी स्वतन्त्रतासेनानी अपि च इत्योत्यधिक मेवासीत् तोमरः सर्वकारः प्रावोचत् यत् परिष्कृतं कृषिविधेयकं कृषकाणां हितं ध्वात्वा पारितम् अस्ति नवदिल्याम् अद्य वार्ताहरान् समबोधयत् कृषिमन्त्री नरेन्द्रसिंह तोमरः न्यगादीत् यत् कृषकाः न हि केवलं खाद्यान्न पणे एव प्रत्य्त कुत्रचिदपि नैजम् उत्पादं निजनिर्धारितमूल्ये विक्रेत् समर्थाः सन्तु इति निधाय कृषिविधेयकं संशोधनं विहितमासीत् प्रशासनं अब्रवीत् यत् संशोधितं विधेयकमवलम्ब्य कृषकैः समं सविस्तरं परिचर्चार्थ वयं तत्परा स्मः सममेव श्रीतोमरः एतदपि प्रत्यपादयत् यत् केन्द्रं कृषकान् यथासम्भवं परामृशति यत् नूतन विधेयकेन न्यूनतम समर्थन मूल्ये न कश्चित् द्वष्प्रभावो भविष्यति अत्र सन्दर्भे विचार विनिमयं विधात् प्रशासनेन कृषकसंगठनेभ्यः प्रस्तावः प्रेषितः सीत किंच कृषकप्रतिनिधिभिः प्रस्तावोयं निराकृतः सर्वकारः सम्बद्धैः कृषकैः सह प्रसन्नमनसा विचार विनिमयाय तत्परः अस्ति प्रकाश जावडेकरः पर्यावरणमन्त्रिणा प्रकाश जावडेकर महोदयेन प्रोक्तं यत् जलवाय् परिवर्तनं अकस्मात् जायमानं परिवर्तनं नास्ति एतत् विगतशताब्द्यारभ्य पर्यावरणस्योपरि पतितानां दृष्प्रभावानां परिणामो विदयते अमुना इदं वक्तव्यं पेरिससन्धेः पञ्चवर्षपूर्त्यावसरे नवदेहल्यां उक्तम् अत्रावसरे इदमपि उदीरितं यत् भारतं जलवायुपरिवर्तनं सम्बद्धसंकटं समाहतुं दृढ़तया प्रतिबद्धतां प्रदर्शयति अत्रैव इदमपि प्रोक्तं यत् भारतं पेरिससन्धेः नियमान् अक्षरशः परिपालयति अत्रैव एतदपि संसूचितं यत् प्रधानमन्त्री नरेन्द्रमोदी पेरिसजलवाय्सन्धेः पञ्चवर्षपूर्ति अवसरे श्वो जलवायुशिखरसम्मेलनं सम्बोधयिष्यति

संक्रमितजनानां संख्या न्यूनीभूय त्रि दशमलव सप्त एक प्रतिशन्मिता संजाता रुग्णानाम् संख्या प्रतिदिनम् न्यूनायते देशे कोरोणापरीक्षणमानं पंचकोटितोप्यधिकम् जातम् स्वस्थताप्रतिशतता संवर्ध्य पंचनवति दशमलव द्वौ त्रयपरिमिता जाता विगते अहोरात्रे भ्योपि एकोनविंशत्सहघाणि महामार्या नूतनानि प्रकरणानि पृष्टिंगतानि तत्रैव पंचशतोत्तर सप्तत्रिशत्सहस्रमिताः जनाः स्वस्थताम् गताः देशे रुग्णानां संख्यापेक्ष्या स्वस्थीभूतानां संख्या पंचविंशतिग्णिता अधिका अवर्तत इत्थं प्राप्त सूचनान्सार कोरोनास्वस्थतामितिः पञ्चनवति दशमलव द्वौ त्रय जाता हर्षवर्धनः स्वास्थ्यमन्त्री डॉ हर्षवर्धनः न्यगादीत् यत् वयं कोरोनाप्रसंगे प्रभावोत्पादीयोजनया सह रणनीतिकप्रबन्धन द्वारा वैश्विकस्तरे भारतं उन्नतस्थितौ स्थापने सक्षमाः अभवाम सः उक्तवान् प्राणहानिः प्रतिशतमपि एकदशमलव चत्र्पच वैश्विक प्रतिशतात् न्यूनमस्ति

अत्रोपलक्ष्ये विभिन्ना धर्मग्रुव सर्वधर्म प्रार्थना विहितवन्त अत्रावसरे श्री मोदी न्यगादीत् यत् नृत्नं संसद् भवनं तादृक्स्थानं भविता यत्र प्रवर्तमानशताब्दे भारतस्य आकांक्षा प्रपूरयिष्यन्ते भवनमिदं आत्मनिर्भर भारत निर्माणस्य साक्षित्वेन भविष्यति प्रधानमंत्री प्रावोचत् यत् नाहं कदापि तत्क्षणं विस्मरिष्यामि यदा चतुर्दशोत्तरद्विसहस्रतमे वर्षे प्रथमं तावत् अहं संसद्धवनं ससम्मानं नत्वा प्रविष्टवान् प्रधानमन्त्रिणोक्तं यत् अत्याध्निक सुविधा सम्वलितं नूतनं संसद् भवनमिदं सांसदानां कौशलवर्धने सहायकं सेत्स्यति अवसरे अस्मिन् लोकसभायाः अध्यक्षः ओम् बिरला राज्यसभायाः उपसभापतिः हरिवंश नारायणसिंह गृहमन्त्री अमितशाहः इत्यादयः नेतारः अपि केन्द्रियमन्त्रिणः सांसदाध उपस्थिताः आसन् प्रधानमन्त्रिणा प्रोक्तं यत् भवनमिदं भारतस्य आधारभूतविचाराणां प्रतीकात्मकं भविष्यति इति लोकसभा अध्यक्ष ओम् बिरला समारोहं समबोधयत् अब्रवीत् यत् साम्प्रतिके अस्मिन् संसन्द्रवने नासीत् आधारभूतस्य परिवर्तनविस्तारस्य काचित् सम्भावना अयं हि कारणं नूतनसंसन्द्रवननिर्माणस्य आवश्यकता आसीत् भवन्द्रि ज्ञेयं यत् नवे भवननिर्माणकार्ये एकसप्तत्युत्तर नवशतं कोटि धनराशे व्ययो भविता त्रिकोणाकारगतस्य एतन्नूतन भवनस्य सज्जता भारतीय संस्कृति क्षेत्रीय कला शिल्प वास्तुकलानां विविधरूपानुगुणं भविता निर्माणे हरित प्रौद्योगिक्या प्रयोगो विधास्यते पर्यावरणानुकूलितं भविष्यति भवनम्